घटनेयं प्राणावायो वितरणक्रमे वायो निस्सरणेन अभवत

अस्मिन् प्नीतावसरे राष्ट्रपति रामनाथ कोविंद उपराष्ट्रपति एमवेंक्यानायड् प्रधानमंत्री नरेन्द्रमोदी च देशवासिभ्य श्भकामना प्रेषितवन्त कोविड सन्देश प्रिया श्रोतार कोविड ऊनविंशतिइत्यस्या संक्रमणे वृदधि पूनर्जायते एतदर्थ निवेदयते यत् असावधानतां मा व्यवहरन्त् सममेव पञ्चचत्वारिंशत वर्षात अधिकवयै सर्वै जनै सुच्यौषधं स्वीकरणीयम् भवन्त भवत्यश्च सुरक्षाया उपायव्रयस्य संकल्पं स्वीकृत्य सुरक्षिता भवन्तु म्खनासिकावरकं सन्धारयन्त् दहिकदौर्यं परिपालयन्त् पाणिपादं च यथासमयं प्रक्षालयन्त् औषधं अपि समवधानता अपि

भारतदेश शीघ्रातिशीघ्रतया त्रयोदशकोटितोऽपि अधिकजनेभ्य सूच्यौषधं दत्वा विश्वे प्राथम्यं भजते स्वास्थ्यमंत्रालयान्सारि विगत चत्र्विशति होरास् त्रिंशल्लक्षमितानि सूच्यौषधानि जनेभ्य प्रदत्तानि अनेनव सह न्तनप्रकरणानां मृतकानां च संख्यायामपि अपूर्वप्राय वार्धक्यं परिलक्षति विगत अहोरात्रे कोविड एकोनविंशत्या त्रयोविंशत्यधिक द्विसहस्रजना दिवंगता लक्षत्रयश्च प्रायश नृतन सकारात्मकानि प्रकरणानि परीक्षितानि इति स्वास्थ्यमंत्रालयेन विज्ञापितम् मंत्रालयेन इदमपि प्रोक्तं यत् सम्प्रति देशे सप्तपंचाशत्सहस्राधिक एकविंशतिलक्षानि कोविडस्य सक्रिय प्रकरणानि सन्ति स्वस्थतामिति च अपचीय पंचाशीति प्रतिशतात्मकमेव अस्ति कोविड परीक्षणम आईसीएमआर इति भारतीय औषध शोधसंस्थया निगदितम् यत् दशलक्षाधिक सप्तविंशतिकोटिमिता जना कोरोणापरीक्षणेन परीक्षिता विगत अहोरात्रे एव एकोनचत्वारिंशत् सहस्राधिक षोडशलक्षजना अनेन परीक्षणेन परीक्षिता परिगणना च न्यान्तर्येण वरिवर्धमाना अस्ति

यत्र हि कोवम्र्सिन इत्यस्य प्रभावीत्वं प्ष्टि कृतमस्ति अन्या ब्राजिलादि देशप्रपि महाराष्ट प्रधानमंत्री महाराष्ट्रप्रदेशे प्राणवायो निस्सरणजन्य घटनायां प्रधानमन्त्रिणा नरेन्द्रमोदिना गृहमन्त्रिणा अमितशाहेन प्रदेशस्यास्य राज्यपालेन भगतसिंह कोश्यारिणा च गभीर शोकोव्यक्तः घटनेयं प्राणावायो वितरणक्रमे वायो निस्सरणेन अभवत्

राज्यसर्रकारेण घटनाया परिशीलनाय उच्चस्तरीय निरीक्षणदलं गठितम् उक्तं च न केऽपि दोषिणमुक्ता स्थास्यन्ति

पोखरियाब राष्ट्रियशिक्षामंत्री रमेशपोखरियाल निशंक कोरोणाया सकारात्मक परीक्षणावाप्त अस्ति

तेन प्रतिपादितं यत् राज्य पूर्णपिधानम् अन्तिमविकल्परूपेण एव स्वीकर्तव्यम् गतदिने कोविड संक्रमणस्य स्थितिम् अभिलक्ष्य राष्ट्रं सम्बोधयन् प्रधानमन्त्री प्रोक्तवान् यत् राज्य लघ् अतिसंक्रमित क्षेत्रस्य निर्माणं कृत्वा संक्रमणस्य प्रसारं रोदध् प्रयासाः करणीयाः सः प्रावोचत् यत् आर्थिक स्वास्थ्यं देशवासीनां च स्वास्थ्यं द्वे अपि महत्वपूर्णे स्तः प्रधानमन्त्रिणा कथितं देशस्य नक्केष भागेष प्राणवायोः अभ्यर्थनायां वृदधिः दृष्टा एतदर्थ केन्द्रीय सर्वकारः राज्यसर्वकाराश्च निजीक्षेत्रक्ष साकं मिलित्वा प्राणवायोः उपलब्धतां सुनिश्चीकर्त्र प्रयासरताः सन्ति सममेव सर्वकारेण प्राणवायोः आपूर्तये परिवहनस्य विशेष सौविध्यस्य अपि विकासः क्रियते तेन उक्तं यत् शीघ्रमेव राज्येष् नूतनानि प्राणवाय् संयन्त्राणि भविष्यन्ति सहब एकलक्ष नवीन प्राणवाय् कोषाः अपि राज्येभ्य प्रेषयिष्यन्ते

सहब श्रीमता मोदिना चिकित्सकेभ्य स्वास्थ्यकर्मिभ्य स्वच्छताकर्मिभ्य सुरक्षाकर्मिभ्यश्च साध्वादाः प्रदत्ता तेषां योगदानाय कोरोणां विरूध्य चलायमाने युद्धे पुरोधा योद्धृरूपेण च कार्यनिष्पादनाय

इदानीं देशे चिकित्सकीय प्राणवायोः दप्निकी उत्पादन क्षमता ऊनचत्वारिंशत् सप्तशतोतर चत्र्सहस्राधिक मीट्रिक टन परिमिता अस्ति अवधेयास्पदम् अस्ति यत् फरवरी मासस्य अन्तिम सप्ताह पर्यन्तं प्राणवायोः उत्पादन क्षमता त्रिसप्तत्य्तर द्विशताधिक एकसहस्र मीट्रिक टन परिमिता आसीत्

यत्र च वार्ताहरण उक्तमासीत् सप्तशतप्रतिशतादधिकेन निर्यात क्रियते इति परं सर्वकारेण स्पष्टीकृतं यत् शून्यदशमलव चत्ः प्रतिशतात् अपि न्यूनं वार्षिकोत्पादनस्य प्राणवायो देशात् बहि निर्यात भवति रामनवमी आसंसारे अदय भगवत रामस्य प्राकट्योत्सव रूपेण रामनवमी पर्वण परिपालनं क्रियते वसन्तर्तौ चप्वश्ल्कनवम्याम् अयोध्याधिपस्य दशरथात्मजस्य जन्मोत्सव परिपाल्यते कोविडकारणेन सम्मर्दहीनायां स्थितौ विभिन्नेष् देवालयेष् अद्य मध्यदिवसे द्वादशवादने सश्रद्धया उत्सवोऽयं परिपालित भगवत विष्णो सप्तमावतारी राम अस्मान् अवत् सदा इति प्रार्थना प्रस्सरं अस्य उत्सवस्य वर्धापनानि आकाशवाणीपक्षतः सर्वेभ्य संस्कृत रसिकेभ्य श्रोतृभ्य अस्मिन् प्नीतावसरे राष्ट्रपति रामनाथ कोविंद उपराष्ट्रपति एमवेंक्यानायड् प्रधानमंत्री नरेन्द्रमोदी च देशवासिभ्य श्भकामना प्रेषितवन्त

इति वार्ता